अस्यां लोकसभायां अधिकं कार्य ं समनुष्ठितम् इति

तेन प्रोक्तं वर्तमान प्रशासनावधौ केन्द्रीय सूचना आयोगस्य नवनिर्मित भवनं निर्मितम् अपि च वर्तमान प्रशासनद्वारा एव नैकेषां राष्ट्ररक्षायै हतिंगताना वीराणा संस्मृतौ इण्डिया गेट इत्यत्र युद्धस्मारकं विनिर्मितं अस्ति प्रधानमन्त्रिणा स्पष्टीकृतं यत् कोरोना इति वैश्विक संक्रमण काले अपि संसद कार्यजातम् अबाधगत्या प्रवर्तितम् तेन प्रोक्तं नूतन नियमान्तर्गतं ऐतिहासिकै उपायै सह उभयो सदनयो कार्याणि सम्पादितानि अपि च संसदि प्रत्येकं दलै साहाय्यम् उपकल्पितम् श्रीमोदिना लोकसभाध्यक्ष ओम बिरला अपि वर्धापित तेन अवादि यत् षोडशी लोकसभाया कार्यकाल अवसित अस्मिन्नवधौ राष्ट्रस्य प्रगत्यै विकासाय नैके एतिहासिक निर्णया स्वीकृता अपि च सप्तदशी लोकसभा गतवर्षे प्रारब्धा अस्मिन्नवधौ अपि नैके महत्वपूर्णनिर्णया स्वीकृता ये हि राष्ट्रं आगामि दशकं उन्नेत् महत्वपूर्णभूमिकां आपादयिष्यंति इति

पंचाशीति लक्षाधिका जना स्वास्थ्यलाभं अवाप्तवन्त येन हि प्रत्यवाप्तिमिति प्रतिशतं षड् अष्ट दशमलवोत्तर त्रिनवतिमिता अस्ति संवृत्ता अवधेयास्पदं वर्तते यत् देशे साम्प्रतं यावत् द्विषष्ठी सहस्राधिक पंचाशीतिलक्ष रोगिण उपचारानन्तरं गृहमुपेता विगते अहोरात्रे एकचत्तवारिशद सहस्राधिका रोगिण पूर्णरूपेण स्वस्थीभृता

साम्प्रतं देशे प्राय सार्थ चतुर लक्ष रोगिण उपचार्यन्ते स्वास्थ्यमन्त्रालयेन प्रतिपादितम् यत् मृत्युमितौ नैयून्य आपादितम् मृत्युमिति प्रतिशत चत्वारि षड् दशमलवोत्तर एकम् वर्तते मन्त्रालयेन इदमपि संसूचितम् यत् विगते अहोरात्रे एकादशाधिक पंचशतं जना कालग्रासीभूता